जम्मुकश्मीरस्य राज्यपालेन सत्यपाल मलिकेन श्रीनगरस्थे सचिवालये प्राशासनिक कार्यालयेष् च कार्यारम्भाय निर्देशा प्रदत्ता

श्रीमोदिनो यात्रा भारत भूटानयो सम्बन्धानां कृते महत्त्वपूर्णा विद्यते प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी निजप्रथम कार्यकालम् आवश्यकतापूर्तिकरम् आगामि कालखण्ड च सामान्यजनानाम् आशापेक्षापूर्ति जनकं प्रत्यपादयत् श्रीमोदिना प्रोक्त यत् स्वतन्त्रताया पव्चसप्तति वर्षाणि यावत् कृषकाणाम् आयद्विग्णीकरणं निर्धनपरिवारेभ्यो गृहसौविध्यम् प्रतिगृहं विद्यत्सौविध्यपूर्णम् प्रतिग्रामम् अन्तर्जाल सौविध्ययुतं च भवितव्यम् तेन सागर जनितार्थव्यवस्था सबल प्रतिपादिता सममेव उक्त यत् ग्रामेभ्य संवर्धितवस्त्रनि वैश्विकविपणौ प्रापवित् ग्रामेष् आवासजलपूर्ति च प्रशासनस्य प्रमुखोद्दश्यानि वर्तन्ते जम्मुकश्मीर राज्यपाल जम्मूकश्मीरस्य राज्यपालेन सत्यपाल मलिकेन श्रीनगरस्थे सचिवालये प्राशासनिक कार्यालयेष् च कार्यारम्भाय निर्देशा प्रदत्ता अमुना प्राशासनिक कर्मचारिभ्य तेषां कार्यालयं यावत् सम्प्रापयित्ं प्रबन्धादेशोऽपि प्रदत्त राज्यपालेन एते निर्देशा परामर्शकै मुख्य सचिवेन च साकम् विहितोपवेशनानन्तरं प्रदत्ता श्रीमलिकेन विज्ञापितं यत् जम्मूकश्मीर लद्दाखे च स्वतन्त्रतादिवसोत्सव हर्षोल्लासेन आमानित राज्यपालेन निषेधाज्ञावधौ सहयोगाय जम्मूकश्मीरवासिभ्यो धन्यवाद प्रदत्त आश्वासितं च यत् प्रबन्धा शनै शनै अपाकरिष्यन्ते सर्वोच्चन्यायालय सर्वोच्चन्यायालयेन प्रोक्तं यत् संविधानस्य सप्तत्यधिक त्रिशतान्च्देस्य अन्तर्गतं जम्मूकश्मीरस्य विशेषस्तर निराकरणात् पूर्व राज्ये वार्ताभिकरणेष् प्रतिबन्धनिराकरणात् पूर्व च किव्चित् काल अपेक्षते अस्मिन् विषये न्यायालये याचिका प्रस्तुतास्ति वादश्रवणावधौ केन्द्रेण न्यायालये प्रतिपादितं यत् जम्मूकश्मीरस्य स्थितौ परिष्कारो दृश्यते राज्यात् प्रतिबन्धा शनै शनै अपाकरिष्यन्ते मुख्यन्यायाधीशस्य न्यायमूर्ते रव्जनगोगोइन अध्यक्षतायां खण्डपीठेन याचिकायां वादश्रवाणाय नूतनो दिवस नैव निर्धारित जावडेकर पर्यावरणमन्त्री प्रकाशजावडेकर उदघोषयत् यत् सकृत्प्रयुक्ताकरदमुक्तं भारतं निर्मातुं बृहदभियानं प्रारप्स्यते अम्नोक्त यत् विषयेऽस्मिन् राज्यप्रशासनानि समेत्य सम्बद्धपक्षै साकम् चार्चा विधास्यते अनन्तरम् बृहद् जनाभियानाय कार्याचरणं भविष्यति घोषणेऽयं गतदिने ब्राजीलस्थे साओ पावलो इत्यत्र पर्यावरणमन्त्रिणा कृतासीत् इत प्राक् श्रीमोदिना रक्तद्गस्य प्राचीरात् स्वतन्त्रतादिवस सम्बोधने एतद् विषयिणी घोषणा कृता

आकाशवाण्या सह सम्भाषणे भूटानस्य राजदृत रुचिरा कम्बोज प्रावोचत् यत् श्रीमोदिनो यात्रा भारत भूटानयो सम्बन्धानां कृते महत्त्वपूर्णा विद्यते यात्रावधौ देशद्रयस्य मध्ये दश सन्धय प्रमाणीकरिष्यन्ते